अद्य केन्द्रशासिते प्रदेशे जम्मूकश्मीरे जिलाविकासपरिषद निर्वाचनानां चतुर्थचरणे मतदानं आयोज्यते

भारतम् ऑस्ट्रेलिया देश च अन्तरा प्रचाल्यमाणाया तिसुणां विशति प्रतिविंशति स्पर्धामालिकाया ह्य सिडनी क्रीडांगणे समायोजिता द्वितीया स्पर्धा भारतेन षड् क्रीडकानां सुरक्षापूर्वकं विजिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्प स्वीकुर्वन्तु मुखावरंक सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

चतुर्दशमलव उत्तर नवविंशति किलोमीटरमितं मेट्रोमार्गे ताजमहल आगरा किला सिकन्द्राप्रभृतीनि स्थानानि युक्तानि सन्ति इद कार्य पञ्चभि वर्षे सम्पूर्णता यास्यति अपि चास्य निर्माणमुल्ये नवसप्तति अधिक त्रिशतोत्तर अष्टसहम्रकोटि रूप्यकाणि अनुमानित वर्तते जम्मूकश्मीर निर्वाचनम् अद्य केन्द्रशासिते प्रदेशे जम्मूकश्मीरे जिलाविकासपरिषद निर्वाचनानां चतुर्थचरणे मतदानं भवति मतदानं प्रात सप्तवादने प्रारभ्य द्विवादन यावत् निश्चितम् अस्मिन् चरणे चतुखिंशत् निर्वाचनक्षेत्रेष् निर्वाचनानि आयोज्यन्ते पञ्चाशतपञ्चायत प्रमुखानां कृते उपनिर्वाचनानि अपि च पञ्चायतसदस्यानां उपनिर्वाचनानि अपि अद्य आयोज्यन्ते सीबीआई यूनिटेक केन्द्रीय परीक्षण ब्यूरोसीबीआई इति द्वारा यूनिटेक् लिमिटेड् इत्यस्य पूर्व प्रबन्धन निदेशकस्य सञ्जयछाबराया विरुद्ध तस्य पित् रमेशचन्द्रस्य अग्रजस्य अजयचन्द्रस्य च विरुद्ध कैनरावित्तकोष प्रवञ्चनाप्रकरणे प्रकरणम् उल्लिखितम्

अस्य परिषद मुख्य कार्य आयुषनिर्यातस्य प्रचार इति भविष्यति सममेव सर्वै इदमपि निश्चित यत् सम्पूर्ण आयुषक्षेत्र मिलित्वा मूल्य उत्पादनगुणवत्ताश्चेति विषयो निर्यातवर्धनाय कार्य विधास्यति

प्रात सार्धसप्तवादने मतदानं प्रारभते अस्मिन् प्रथमे चरणे उदालगूड्या वक्सायाश्च जिलयो एकविंशति आसनेष् निर्वाचनानि आयोज्यन्ते

भारते अनारत प्रत्यवाप्निमितौ परिष्कारो जाजायते देशे संक्रमण प्रतिरोधी वीराणां प्रयासेन प्रत्यवाप्निमिति त्रि सप्त दशमलवोत्तर चतुर्नवति प्रतिशतं यावत् विवर्धिता

क्रिकेट भारतम् ऑस्ट्रेलिया देशं च अन्तरा प्रचाल्यमाणाया तिसुणां विंशति प्रतिविंशति स्पर्धामालिकाया ह्य सिडनी क्रीडांगणे समायोजिता द्वितीया स्पर्धा भारतेन षड् क्रीडकानां सुरक्षापूर्वक विजिता भारतेन पणकं विजित्य क्षेत्ररक्षणं चितम् ऑस्ट्रेलिया दलं च क्रीडनाय समाहतम् ऑस्ट्रेलिया दलेन भारताय नवत्यधिकैकशतं धावनांकानां लक्ष्यं उपस्थापितम्